जम्मूकश्मीरस्य उपराज्यपालेन गिरीश चन्द मुर्मवर्येण राज्ये केन्द्रीय योजनानां लाभं सुनिश्चेत् संसाधनानां समयबद्धरीत्या प्रयोगार्थं बलं प्रदत्तम्

झारखंड निर्वाचन निर्वाचनायोगेन झारखण्डे भावि विधानसभासनेभ्य निर्वाचनोद्वोषणा विहिता राज्ये एकाशीति विधानसभासनानां कृते पञ्च चरणेष् मतदानानि समन्ष्ठास्यन्ते नवदिल्यां वार्ताभिकरणै संवाद प्रसंगे प्रमुखो निर्वाचनायुक्त सुनील अरोड़ा प्रावोचद् यत् राज्ये प्रथमचरणस्य मतदानं नवम्बर त्रिंशद्दिनांके सुनिधितमस्ति तदन् दिसम्बरमासस्य सप्त द्वादश षोडश विंशति दिनांकेषु क्रमश द्वितीय तृतीय चतुर्थ पञ्चमचरणेषु मतदानानि आयोक्ष्यन्ते मार्केल यात्रा प्रधानमन्त्री नरेन्द्रमोदी न्यगादीद यत् आतंकवादम् उप्रवादञ्च निराकत्त् भारत जर्मनीदेशौ पारस्परिक बहपक्षीय पदक्रमान् अतोऽपि संवर्धयिष्यत जर्मनीशासनाध्यक्षेण एंगेला मार्केल वर्येण समं समाचरित शिष्टमण्डलस्तरीय वार्तानन्तरं श्रीमोदी वक्तव्यमिदं प्रकाशितवान् उपवेशनावधौ देशयोर्मध्ये सम्बन्ध दृढीकरणपराणि शिक्षाप्रभृतिष् क्षेत्रेष् नैकानि सन्धिपत्राण्यपि हस्ताक्षरितानि ध्यातव्ययस्ति यत् जर्मनी शासनाध्यक्षा गतरात्रौ त्रि दिवसीयात्रायै भारतं सम्प्राप्तासीत् डॉक्टर मार्केल अद्य राष्ट्रपतिं रामनाथकोविंदमपि मेलिष्यति प्रधानमंत्री थाईलैण्ड यात्रा प्रधानमन्त्री नरेन्द्रमोदी षोडशे आसियान भारत शिखरोपवेशने तदनु चतुर्दशे पूर्वैशिया शिखर सम्मेलने तृतीये च क्षेत्रीय व्यापकार्थिक सहभागिता सम्मेलने प्रतिभागितां विधातं श्व थाईलैण्डं प्रस्थास्यति द्वो नवदिल्यां विदेश मन्त्रालये पूर्वीयदेशानां सचिवेन विजय ठाकुर सिंहेन संसूचितं यत् थाईलैण्ड देशस्य प्रधानमन्त्रिण निमन्त्रणे श्रीमोदी तत्र यास्यति

पर्यावरण मन्त्री पर्यावरण जलवायु परिवर्तनमन्त्री प्रकाश जावडेकर न्यगादीद यत् परम्परागतरीत्या ईंधनसौविध्येन सञ्चालितानि सर्वाण्यपि पञ्चलक्ष वाहनानि क्रमेण ई वाहन इति पर्यावरणान्कूलित सञ्चालनप्रक्रिया रूपे परिवर्तयिष्यन्ते एतादृशानां ई वाहनानां मृत्येष् न्यूनता आपादयिष्यते पर्यावरण प्रद्षण नियन्त्रणेऽपि निर्णयोऽयं सहायक सेत्स्यति नवदिल्यां सूचना प्रसारण मन्त्रालय द्वारा क्रीतानि विद्युत्सौविध्येन चलायमानानि वाहनानि ध्वजं प्रदर्श्य प्रेषणावसरे वार्ताहैर सम्भाषमाण प्रकाशजावडेकर एतत्सर्वं संसूचितवान् जम्मूकश्मीर जम्मूकश्मीरस्य उपराज्यपालेन गिरीश चन्द मुर्म्वर्येण केन्द्रेण प्रायोजितानां योजनानां जनेष् लाभ सुनिश्चेत् संसाधनानां समयबद्धरीत्या प्रयोगार्थं बलं प्रदत्तम् असौ गतदिवसे श्रीनगरे नागरिक सचिवालयीय अधिकारिभि सचिवैश्च सार्धं मन्त्र विनिमयं समाचरति स्म